संसदि रचनात्मक मुक्त चर्चार्थ च प्रधानमन्त्रिण समाहवानम्

संसद् संसद शीतकालीन सत्रमद्य प्रभृति प्रारब्धम्

सत्रात् प्राक् वार्ताहरै सम्वदन् काले प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् संसदि सद्भावपूर्ण वातावरणे म्क्त चर्चा भवितव्या

श्रीमोदी राज्यसभाया सार्द्धद्विशत सत्रम्पलक्ष्य अभिभाषते स्म तेन भणितं यत् विगत दिवसेष् असौ सर्वै राजनीतिक दलीय नेतृभि मिलितवान् श्रीमोदिना प्रतिपादितं यत् राज्यसभा राष्ट्राय तस्य विकासाय च महत्त्वपूर्णा भूमिका निर्व्यूढा डॉ भीमराव अम्बेडकरेण राष्ट्रोन्नतये महत्त्वपूर्ण योगदानं प्रदत्तमु तेन भणितं यत् राज्यसभया ऐतिहासिक विधेयका पारिता यथा त्रितलाक आर्थिक रूपेण निर्धनेभ्य आरक्षणं वस्त् सेवा कर अन्च्छेदं सप्तत्युत्तर त्रिशत संख्याकम् चेति इत प्राक् राज्यसभाध्यक्षेण वेंकैयानायड्ना भणितं यत् समाजार्थिक प्ररूपे राज्यसभया अर्थपूर्णा भूमिका निर्व्यूढ़ा तेन भणितं यत् राज्यसभा सप्तषष्टि वर्षाणि प्रप्रितानि न्यायमूर्ति न्यायमूर्ति शरद अरविन्द बोबडे भारतस्य म्ख्य न्यायाधीश सञ्जात राष्ट्रपतिना रामनाथ कोविन्देन राष्ट्रपति अवने तस्मै सप्तचत्वारिंशत् तमीय म्ख्यन्यायाधीश रूपेण शपथम् अंगीकारितम् न्यायमूर्ते रञ्जन गोगोई वर्यस्य रविवासरे सेवानिवृत्तेरनन्तरं श्रीबोबडे वर्येण पदमिदम् अलंकृतम् उपराष्ट्रपति एम वेंकैयानायड् प्रधानमन्त्री नरेन्द्रमोदी लोकसभाध्यक्ष ओम बिरला पूर्व प्रधानमन्त्री डॉमनमोहनसिंह गृहमन्त्री अमितशाह भाजपा वरिष्ठ नेता लालकृष्ण आडवाणी अन्ये गणमान्य जनाश्च अवसरेऽस्मिन् उपस्थिता आसन् नीति विवरणम नीति आयोगस्य उपाध्यक्षेण डॉ राजीव क्मारेण अद्य नूतन भारतस्य स्वास्थ्य प्रणाली संबद्ध एकं विवरणं प्रस्तुतम् अवसरेऽस्मिन् बिल गेट्स वर्योऽपि उपस्थित डॉ राजीव क्मारेणोक्तं यत् आय्ष्मान भारते वर्तमान स्वास्थ्य प्रणाल्या क्षेत्रे विहितोपाया महत्त्वपूर्णा सन्ति जम्मू कश्मीर पनुन पन्न कश्मीरेण प्रतिपादितं यत् संविधानस्य अनुच्छेदं सप्तत्युत्तर त्रिशत संख्याकं निरस्तीकरणं जम्मूकश्मीरं द्वि केन्द्रशासित प्रदेशयो विभाजनं एतत् सदृशोपायानां विषये भान्ति प्रसृणे द्वष्प्रचारे च पाकिस्तान पृथक्तावादी अन्य विध्वंसक संघटनानि पूर्ण बलं प्रदीयन्ते

अस्योददेश्यं क्पोषणम् अपाकृत्य बहक्षेत्रीय संरचना विकासं भवति अस्यान्तर्गतं भद्ग पोषकोत्पादाय अष्टविंशत्युत्तर शतेषु कृषि ऋतु क्षेत्रेषु विविध शस्योत्पादे बलं प्रदास्यति

द्विविंशतिश्च वणिता